एक विधायकोपि विभागस्य निग्रहणे अस्ति अपि च उत्तराखण्डे शीतकालिकम् अवकाशानन्तरं केदारनाथ मंदिरस्य कपाटं सम्द्टितम् प्रियाः श्रोतारः कोरोणा महामारीं विरुध्य देश ऐक्य भावनया य्ध्यते भवन्तः अपि यथायोग्य सूच्यौषधं स्वीकृत्य अस्माभि सह स्रक्षाया उपायत्रयस्य सड्कल्पं स्वीक्वन्तु म्खावरकं सन्धारयन्त् सामाजिक दूरतां परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त् अथ वार्ताः विस्तरेण कोविड महामार्या संक्रमितानां रोगिणाम् उपचाराय ट्र डीऑक्सी डी ग्लूकोस इत्याख्यं औषधं प्रथमं तावत् अद्य प्रकाशितम् रक्षा मंत्री राजनाथ सिंहः स्वास्थ्य परिवार कल्याण मंत्री डॉक्टर हर्षवर्धनश्च समभूय एतत् प्रकाशितवन्तौ अवधेयं यत् रक्षा न्संधान विकास संघटनेनन डॉक्टर रेड्डीज़ लैब इति प्रयोग शालया समं सम्मिल्य औषधमिदं विकसितं अस्ति भारतीयौषधि महानियंत्रकेण सद्य एव उक्तस्य औषधस्य आपत्प्रयोगाय अन्मति प्रदत्तास्ति रक्षा न्संधान विकास संघटनस्य वैज्ञानिकान् वर्धापयन् रक्षा मंत्री राजनाथ सिंहः अवदत् यत् टू डी जी औषधं आत्मनिर्भरताया दिशि एकं कोषीयप्रस्तरखण्डम् अस्ति अस्मिन् संकटकाले औषधमिदं आशारूपत्वेन प्रतिपादितम् रक्षामन्त्रिणा प्रोक्त यत् एतेन औषधेन महामारिपीडितानां प्राणवायौ निर्भरता चत्वारिंशत् प्रतिशन्मिता न्यूना भविष्यति अपि च तेनोक्तं यत् महामार्या विरुद्वे प्रवर्तमाने संघर्षे केन्द्रं सर्वसम्भवं समाचरति प्रधानमंत्रिण नरेन्द्र मोदिन मार्गदर्शने सकलसमस्यानां समाधानं विहितमस्ति चिकित्सा सौविध्यानां देशे नास्ति अल्पता चिकित्सकीयप्राणवायोः उत्पादने उल्लेखनीया प्रगतिः समागतास्ति रक्षामन्त्रिणा प्रोक्तं यत् संक्रमणप्रकोपकाले अस्मिन् आवश्यकवस्तूनाम् आपूर्त्यर्थ सेनापि यथासम्भवं समाचरति अपरत्र उक्तस्य कोविड रोध्यौषधस्य विकसाय स्वास्थ्यमन्त्री डॉक्टर हर्षवर्धन अपि रक्षा अनुसंधानविकास संघटन अथ डॉक्टर रेड्डीज़ लैब प्रयोगशालाया वैज्ञानिकानां प्रयासान् अनुशंसितवान् एकवर्षाभ्यन्तरे कृतस्य कठोरपरिश्रमगतस्य परिणामत्वेन एतदौषधस्य विकास अमुना प्रख्यापित नैदानिक परीक्षणेन ज्ञातं यत् उपचर्यमाणाना रोगिणां शीघ्रं स्वास्थ्यलाभाय अथ च प्राणवायौ तेषां निर्भरताया न्यूनीकरणे औषधमिद सहायकरमस्ति

एतेष् एकादश लक्षाधिक चत्र्दश कोटितः अधिकाः जनाः सूच्यौषस्य प्रथम मात्रां प्राप्तवन्तः अपरतः प्रायः सप्तदश लक्षाधिक चत्ष्कोटि मिताः जनाः सूच्यौषधस्य मात्रा द्वयम् अपि प्राप्तवन्तः स्वास्थ्य मन्त्रालयेन सूचितं यत् गतास् चत्र्विंशति होरास् एकनवति सहस्राधिक षड् लक्ष मितेभ्यः लाभार्थिभ्यः कोविड् ऊनविंशति प्रतिरोधि सूच्यौषधं प्रदत्तम् कोविड् सूच्यौषध अभियानस्य तृतीय चरणं अस्य मासस्य प्रथम दिनाङ्कात् आरब्धम् एतद् अभियानान्तर्गतम् अष्टादशतः चत्श्चत्वारिंशत् वयोवर्गीयेभ्यः जनेभ्यः इद सूच्यौषधं दीयते अत्रान्तरे गतास् चत्र्विशति होरास् षडशीति अधिक त्रिशतोत्तर एकाशीति सहस्राधिक द्वि लक्ष मितानि नूतनानि कोरोणा प्रकरणानि देशे समक्षम् आगतानि

सम्प्रति संक्रमितानां संख्या अपचीय प्रतिशतं चतुर्दश दशमलव शून्य नव मिता जातास्ति स्वास्थ्य मन्त्रालयेन उक्तं यत् इदानीं प्रायः षोडश सहस्राधिक पञ्चत्रिंशत् लक्ष मिताः जनाः कोरोणया संक्रमिताः सन्ति ते सम्प्रति विभिन्नेष् चिकित्सालयेषु स्व स्व गृहेषु वा उपचर्यन्ते तत्रान्तरे गतदिने अष्ट सप्तति सहस्राधिक त्रि लक्ष मिताः जनाः अस्मात् रोगात् विमुक्ताः इत्थं सम्प्रति स्वस्थता मितिः प्रतिशतम् अष्टचत्वारिंशत् दशमलव अष्ट एक मिता जाता अस्ति आहत्य देशे अध्नावधि एकादश लक्षाधिक द्वि कोटितः अपि अधिकाः कोरोणा रोगिणः स्वस्थीभूताः ध्यानास्पदम् अस्ति यत् सम्प्रति महाराष्ट्र कर्णाटक छत्तीसगढ दिल्ली तमिलनाडु उत्तरप्रदेश पंजाब मध्यप्रदेश गुजरात केरलेष् संक्रमणस्य सर्वाधिकानि प्रकरणानि सन्ति एतेष् दशसु राज्येष् पञ्च सप्तति प्रतिशत नूतनानि कोरोणा प्रकरणानि पुष्टीकृतानि स्वास्थ्य मन्त्रालयेन सूचितं यत् गतदिने षडधिक एक शतोत्तर चतुस्सहस्र जनाः संक्रमणात् मृत्युम् उपगताः इत्थं देशे मृतकानां संख्या वर्धित्वा आहत्य नवति अधिक त्रिशतोत्तर चतुस्सप्तति सहस्राधिक द्विलक्ष मिता जाता भारतीय आयुर्विज्ञान अनुसन्धान परिषद् सूचितवती यत् परीक्षण अभिज्ञान उपचार आदिभिः एकत्रिंशत् लक्षाधिक चतुष्षष्टि कोटि मितानि कोविड् परीक्षणानि जातानि शीर्ष चिकित्सा संस्थानेन उक्तं यत् गतासु चतुर्विशति होरासु त्रिसप्तति सहस्राधिक पञ्चदश लक्ष मितानि कोविड् परीक्षणानि जातानि देशे सम्प्रति द्विचत्वारिंशत् अधिक पञ्चशतोत्तर द्वि सहस्र संख्याकेषु केन्द्रेषु कोविड् परीक्षणानि भवन्ति संस्कृतवार्ताः इदानीं आकाशवाणीतः प्रसार्यते

सममेव एक विधायक मदनमित्रा अपि विभागेन निगडित कार्यमिदं अद्य प्रात एव विभागेन सम्पूरितम् अस्मिन् प्रकरणे कोलकाताया पूर्वमहापौरम् सोहन चटर्जिनं अपि केन्द्रीयान्वेषणविभाग निगडितवान् अस्ति समेपि निगडिता नारदास्टिंगऑपरेशन इत्यस्मिन् प्रकरणे अवैधधनसंग्रहणे आरोपिण सन्ति साम्प्रतं कोलकातास्थिते केन्द्रीयान्वेषणविभागस्य मुख्यालये आनीता सन्ति न्यायालयस्य समक्ष च उपस्थापयिष्यन्ते राज्यस्य राज्यपाल जगदीप धनखड़ नातिचिरमेव तृणमूल कांग्रेस्दलस्य आरोपिणां वरिष्ठनेतृणां निगडनाय अन्मतिं प्रायच्छत् सूच्यते यत कतिपयकालपुर्वमेव मुख्यमंत्री ममता बेनर्जी विभागस्य कार्यालयं सम्प्राप्तवती

शीतकालिकं अवकाशानन्तरं वैदिक मंत्रोच्चारपूर्वकं अन्यं च धार्मिक अनुष्ठानपुरस्सरं मंदिरे पूजा अर्चना सम्पन्ना अत्रावसरे मन्दिरं विशेषरूपेण सुसज्जितम् आसीत् कोविड महामारिकारणेन अत्रोपलक्ष्ये मंदिरे पंडितः जनपदप्रशासनस्य कतिपय वरिष्ठा अधिकारिण एव उपस्थिता आसन् अत्रांतरे दैहिक दूरतासन्निभा कोरोनानियमा अपि पूर्णतया परिपालितं गता अवधेयमस्ति यत् राज्य प्रशासनेन संक्रमणस्य प्रकोपं दृष्ट्वा इदानीं चत्रधाम्नो यात्रा निरस्तीकृता अस्ति

एतदतिरिच्य श्वः बद्रीनाथ मंदिरस्यापि कपाटं उद्घाटयिष्यते इति सूचना समधिगतास्ति